विश्व स्वास्थ्य संघेन चीनदेशेऽभिव्याप्तस्य कोरोणा विषाणोः विषये आपत्कालिकम्पवेशनम् आकारितम् राष्ट्रमद्य राष्ट्रपित्ः महात्मगांधिनः पृण्यतिथेरवसरे तस्मै समर्पयति श्रद्धाञ्जलीन्

उपवेशनेऽस्मिन् प्रधानमन्त्री श्रीनरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहः संसदीय कार्यमन्त्री प्रह्नादजोशी कांग्रेसनेतारौ ग्लामनबीआजादः आनन्दशर्मा तुणमूलकांप्रेस नेता डेरेक ओ ब्रायनः राष्ट्रवादी कांप्रेस पार्टीति दल नेत्री सुप्रिया सुले च भागमू अभजन्त एतान् अतिरिच्य लोकजनशक्ति पार्टीतिदलनेता रामविलास पासवानः समाजवादी दलस्य नेता रामगोपालयादवः संसदीय कार्यराज्यमन्त्री अर्जुनराम मेघवालश्चेत्यादयोऽपि उपवेशने उपातिष्ठन्त उपवेशनानन्तर संसदीय कार्यमन्त्रिणा प्रह्लाद जोशी वर्येणोक्तं यत् एषमो वित्तसंकल्पनासत्रे पञ्चचत्वारिशद विधेयकनां प्रस्तवनं सम्भाव्यते अमुनोक्त यत् प्रधानमन्त्रिणा अन्येष्वपि सर्वेष् प्रकरणेष् परिचर्चा विधानं घोषितमस्ति सर्वदलीयोपवेशनं सम्बोधयता प्रधानमन्त्रिणा प्रोदितं यत् प्रशासनं वित्तसंकल्पनासत्रे सर्वविषयेष् परिचर्चायै तत्परम् श्रीजोशी न्यगदत् यद् प्रधानमन्त्री गृहमन्त्री च बारम्वारं निवेदयन्तौ वर्तेते यज्जनाः संशोधित नागरिकता धिनियम विषये विरोधप्रदर्शनं नैव विदध्य्ः यतोहि अनेनाधिनियमेन न कस्यचिदपि नागरिकता निरसनं जायते वित्तसंकल्पनासत्रस्य प्रथमं सत्रं संसदः संयुक्तसत्रे राष्ट्रपतेः सम्बोधनद्वारेण समारप्स्यते ततश्च तत्र आर्थिक सर्वेक्षणं सम्प्रस्तोष्यते असम बोडोलैण्ड एनडीएफबी असमे नेशनल डेमोक्रेटिक फ्रण्ट ऑफ बोडोलैण्ड इत्यस्य चतुर्णामपि गुल्मानां पञ्चदशोत्तर षट् शताधिक एकसहघ्र सदस्यैः अद्य गौहट्यां मुख्यमन्त्रिणाः सर्वानन्द सोनोवालवर्यस्य पुरतः आयुधानि समर्पितानि एतेष् षट्रिशदथिक अष्टशत सदस्याः प्रोप्रेसिव गुल्मस्य ऊनाशीत्युत्तर पञ्चशत सदस्या रब्जन दायमारीति गुल्मस्य द्वि शतजनाश्च साओराइग्वारा गुल्मस्य सन्ति

सर्वोच्चन्यायालयः निर्भया सर्वोच्चन्यायालयेन निर्भया सामृहिक दष्कर्म हत्या प्रकरणे मृत्युदण्ड भाजनीभृतानां चतृणां दोषिणां मध्ये एकस्य दोषिणः प्नर्विचारविषयिणी याचिका प्रत्याख्याता दोषिणा अक्षयकमारसिंहेन याचिकायामस्यां निजमृत्यपाशदण्डस्य स्थगनमभियाचितम् आसीत्

अन्ताराष्ट्रिय स्वास्थ्य नियमानाम् अन्तर्गत संघस्य आपत्कालिक समित्या उपवेशनम् आकरितमस्ति समितिरियं विश्व स्वास्थ्य संघस्य महानिदेशकाय सम्मर्शं प्रदास्यति गांधी प्ण्यतिथि राष्ट्रमद्व राष्ट्रपित्ः महात्मागान्धिनः पण्यतिथेः अवसरे तस्मै सश्रद्ध भावकुसमाञ्जलीन् समर्पयति एषः महात्मागान्धिनो मृत्योः द्विसप्नति तमः पृण्यतिथिः वर्तते